भाजपादल नेता नरेनद्रमोदी अह्य मद्रै गमिष्यति नैर्वाचनिक सभा संबोधयितृम् जीएसटी इति करसंग्रह प्रणाल्या करसंग्रहणे कीर्तिमान् स्थापित अस्ति टेनिशक्रीडायां पूर्वविजेता ऐशबार्टी नियामी ओपन क्रीडाया अन्तिमचक्रे प्रविष्ट कोविड् संचेतना सन्देश प्रियाः श्रोतारः कोरोना महामारीं विरुध्य देश एकता भावनया युध्यते भवन्त अपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सड़कल्पं स्वीकर्वन्त मुख आवरक सन्धारयन्त सामाजिक दुरतां पालयन्तु पाणि पाद च यथा समयं प्रक्षालयन्तु

निर्वाचनम् विधानसभानिर्वाचनस्य द्वितीये चरणे ह्य परिचमबंगालराज्ये अशीतिप्रतिशताधिकम् असमराज्ये चे त्रिसप्तति प्रतितात्मकम् मतदानम् शांतिपूर्णरीत्या अभवत् निर्वाचनयोगेने च निष्पक्षमतदानाय नैकविधा उपाया विहिता असन् प्रत्येकस्मिन् मतदानकेन्द्रे वीवीपैट इति उपकरणस्य अपि व्यवस्था आसीत् येन निर्वाचनस्य पारिदर्शिता संरक्षिता स्यात् अनयो राज्ययो द्वितीयचरयीयमतदानेष् ममता बनर्जी अमिनुलहक श्रभेन्द अधिकारी पीयुषहजारिका हुमायुकबीर सोहोमचक्रवर्ती अशोकडिंडादय क्रीडका अभिनेतार नेतारश्च निर्वाचने संघर्षशीला आसन् सहैव तृतीयचरणाय प्रचाराभियानं तीव्रतां भजते

निर्णयोऽयम् वरिवर्धमानानां कोरोनाप्रकरणानां कारणत्वेन गृहीत